प्रतिरक्षा कार्मिक प्रमुख जेनरल् विपिन रावत विविधान् प्रतिरक्षा शाखा प्रमुखान् निरदिशत् यत्ते अन्तसेवानां समन्वयार्थं निर्धारित कालावधौ स्वीय प्रस्तावान् उपस्थाययेय् केन्द्र प्रशासनं कोटायां शिशूनां मृत्यु क्रमं सद्य अवरोध् राजस्थान प्रशासनाय सर्वसम्भवं साहाय्यम् उपपादयिष्यति

भारतीय विज्ञान संगोष्ठया एतद वर्षीयो विचार्य विन्दरस्ति विज्ञान प्रविधी ग्रामीण विकासश्चेति पञ्च दिवसात्मके एतस्मिन महा संगमे अशेष जगत पंचदश सहसाधिका वैज्ञानिका शिक्षाविद नोबेल् पुरस्कार भाज नीतिनिर्मातार अनुसन्धातारश्च भागमावक्ष्यन्ति

रत्त्रि दरभाष भारतीय रेल् विभागेन यात्रिणां सौविध्यमन्ध्याय सम्प्रति स्वीया द्रभाष संख्या अशेष देशार्थम् एकीकृता एकम् त्रीणि नव इत्येतया अंक त्रयात्मिकया द्रभाष संख्यया सम्प्रति जना सत्वरं स्वीया जिज्ञासा उपशयित्ं परिदेशवनाश्च प्रस्तोत् प्रभविष्यन्ति दरभाषिक सौविध्यमिदम् इदानी द्वादशस् भाषास् सर्वविधैरपि दरभाष यन्त्रै अधिगन्तुं शक्यते स्वास्थ्यमन्त्री कोटा केन्द्र प्रशासनं कोटायां शिशूनां मृत्यु क्रमं सद्य अवरोधुं राजस्थान प्रशासनाय सर्वसम्भवं साहाय्यम् उपपादयिष्यति